गृहमन्त्रिणा अमितशाहेनोक्तं यत् नागरिकतासंशोधनविधेयकेन मुसलिमसमुदाय पूर्वोत्तरराज्यानि च न केनापि प्रकारेण प्रभावितानि भविष्यन्ति प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना उक्तं यत् विधेयकस्य अभ्युपगमनानन्तरं धार्मिकोत्पीडितविरता भविष्यन्ति प्रतिवेशिन

प्रधानमन्त्री नागरिकताविधेयकम् प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना नागरिकता संशोधनविधेयकम् ऐतिहासिकं कथयता प्रोक्तं यत् अनेन विधेयकेन प्रतिवेशिदेशानाम अल्पसंख्यक धार्मिकोत्पीडनात मुक्ति प्राप्स्यन्ति तेनोक्तं यत् विधि सम्भेवत् चेत् तेषां जनानां जीवनेऽस्थिरता लुप्ता भविष्यति ये भारते निवसन्ति परञ्च नागरिकताधिकारेभ्य वञ्चिता सन्ति अद्य प्रात देहल्यां भाजपासंसदीयदलस्योपवेशनानन्तरं संसदीयकार्यमन्त्रिणा प्रह्नादजोशिना उक्तं यत् प्रधानमन्त्रिणा उदीरितं यत् विधिरयं इतिहासे स्वर्णाक्षरै लेखिष्यति गजरातनानावटी आयोग न्यायमूर्तिन नानावटीमेहताया आयोगेन द्वयत्तरद्विसहस्रतमे वर्षे द्वरापन्ने संघर्षे गुजरातप्रशासनं दोषमुक्तीकृतम् अद्य राज्यविधानसभायाम आयोगस्य अन्तिमं विवरणं प्रस्तुतमं विवरणेऽस्मिन उल्लिखितं यत संघर्षोऽयं न केनापि संघटनेन दरापादित अथ च आर बी श्रीकुमार राहुलशर्मा संजीवभट्ट सदृशा वरिष्ठाधिकारिष् आरोपिता सर्वे आरोपा निराधारा गुजरातस्य गृह राज्यमन्त्रिणा प्रदीपसिंहजडेजाया सदने विवरणमिदं प्रस्तृतम् पञ्चवर्षपूर्व विवरणमिदं तत्कालीनस्य राज्यप्रशासनस्य समक्षं प्रस्तुतमासीत् झारखण्ड निर्वाचनम् श्व आयोज्यमाणायै झारखण्डविधानसभानिर्वाचनस्य तृतीय चरणार्थं मतदानप्रकियायै पूर्णसज्जा विहिता सन्ति चरणेऽस्मिन् रांची रामगढ हजारीबाग कोडरमा चतरा गिरीडीह सरायकेला खरसवान जनपदानां सप्तदशासनानां कृते मतदानानि भविष्यन्ति नक्सलप्रभावितेष् द्वादशक्षेत्रेष् मतदानं प्रात सप्तवादनात् अपराह्ने त्रिवादनपूर्वकं यावत् भविष्यति षट्पञ्चलक्ष्याधिकमतदातार क्रिोनत्रिंशन्महिलाभि सहितानां नवोत्तरत्रिशतप्रत्याशिनां राजनैतिकभाग्यनिर्धारणं करिष्यन्ति

श्रीकोविन्देन स्वकीये सन्देशे उक्तं यत् श्रीम्खर्जी कि राष्ट्रभक्त देशस्य नेतृष् अगेप्रण्य वर्तते तेन श्रीम्खर्जिन दीर्घाय् कृते स्वस्थजीवनाय च मंगलकामना प्रदत्ता प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना अपि श्रीमुखर्जिन जनिदिवसोपलक्ष्ये अनेका मंगलकामना प्रस्तुता

प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना उक्तं यत् महाकवि भारतीयार असौ देशभक्त काव्यप्रतिभाया सामाजिकव्यवस्थापनाया अदम्यभावनाया आदर्शमूर्ति वर्तते

भारत मॉलदीव मॉलदीवस्य विदेशमन्त्री अब्दुल्ला शाहिद षष्ठे भारतीय मॉलदीव संयुक्त आयोग सम्मेलने भागं भजितुमद्य दिल्ल्यां सम्प्राप्त